सम्प्रति बंगाल खातौ केन्द्रितः बुलबुल चक्रवातः अद्य तीव्रतरतामापद्य ओडिशा पश्चिमबंगालयोः कतिषुचिद् भागेषु प्रबलां वृष्टिं जनयितुं शक्नोति विंशति प्रतिविंशति क्षेपचक्राणां स्पर्धात्रयात्मिकायां क्रिकेट क्रीडा शुखलायां गतरात्रौ गुजराते प्रवृत्तायां द्वितीय स्पर्धायां भारतेन बांग्लादेशः अष्टभिः क्रीडकैः पराजितः महाराष्ट्रम्प्रशासनसंरचना महाराष्ट्रे विगत मासस्य चतुर्विंशे दिनांके समुद्घोषिताद विधानसभा निर्वाचन परिणामात सप्ताह द्वयाधिककाल व्यत्ययाद अनन्तरमपि तत्र नूतन प्रशासन सरचनामधिकृत्य न काचित् प्रगतिः परिलक्ष्यते तत्र नूतन प्रशासन संरचनायै अद्य अन्तिमो दिवसः इति कृत्वा प्राप्त विजयेष् राजनैतिक वृन्देष् पारम्परिकाणि सन्धि सम्भाषणानि परां काष्ठां भजन्ते सद्यः सम्पन्नेष् निर्वाचनेष् अष्टादशीत्यधिक द्विशत सदस्यात्मिकायां महाराष्ट्र विधानसभायाम् पञ्चाधिक शतमासनानि विजितवतो भाजपा दलस्य षट् पञ्चादशदासनानि विजितवतः शिवसेना दलस्य च मध्ये शासन विषयकं मत वैभिन्न्यमनुसृत्य गतिरोधो यथावत् अनुवर्तत

भारतम्करतारपुरम् पाकिस्तानस्य आधिकारिके दृश्यश्रव्याङ्किते पटले करतारप्र वीथी विषयके एकस्मिन् कार्यक्रमे खालिस्तानीयस्य प्थक्तावादिनः जरनैल सिंह भिंडरावालस्य उपस्थितिम् अभिलक्ष्य भारतेन आपत्तिः व्यक्तीकतास्ति गतदिने नवदिल्ल्यां वार्ताहैरैः भाषमाणः विदेश मन्त्रालयीय प्रवक्ता रवीश कुमारः प्रावोचत् यत् करतास्पर गुरुद्वारां गच्छतां श्रद्धालूनां भावनां आहतीकर्तुं पाकिस्तानेन विहितं एतं पदक्षेपं भारतं कट्वालोचयति

श्रीमता सिंहेन द्वितीय विश्वयुद्वे दिवंगतेभ्यः सैनिकेभ्यः नागरिकेभ्यः च श्रद्धासुमनांसि समर्पितानि